सर्वोच्चन्यायालयेन अलीगढ़ मुस्लिम विश्वविदयालयस्य जामिया मिलिया इस्लामिया विश्वविद्यालयस्य च प्रदर्शनकारिछात्रेष् कथितरूपेण आरक्षिणां द्वर्व्यवहारविषये श्व वादश्रवणं विधास्यते उच्चतमन्यायालयेन उक्तं यत् नागरिकता संशोधन नियमम् विरूध्य समाहवान् परायाम् कांग्रेसदलस्य अथ च त्रिप्राया पूर्वमहाराज़ प्रद्योत् किशोरदेवबर्मनस्य याचिकयो ब्धवासरे वादश्रवणं भविष्यति

झारखण्ड झारखण्डविधानसभा निर्वाचनेभ्य चत्र्थचरणाय मतदानम् अद्य शान्तिपूर्णरीत्या सम्पन्नम् नक्सलप्रभावितक्षेत्रेष् प्रबलसंख्यायां मतदातृभि मताधिकार प्रय्क्तः अस्मिन् चरणे द्वाविंशति महिला समेत्य एकविंशत्यधिकदविशतं प्रत्याशिन वर्तन्ते स्वतन्त्रनिष्पक्षमतदानाय सुरक्षाया व्यापकप्रबन्धा कृता सन्ति

प्रदर्शनेष् सार्वजनिक सम्पत्ते हानौ हिंसकघटनास् च चिन्तां प्रकटयता प्रोक्तं यत् एतादृशघटना शीघ्रं निराकर्त्तव्या अधिवक्तृणां समूहेन न्यायालय अध्यर्थित यत् तत् आरक्षिणां कार्याचरणे संज्ञानं स्वीक्यात् जामिया कलपति जामिया मिलिया इस्लामिया विश्वविदयालयस्य कलपति नजमाअखतर गतदिने विश्वविदयालय परिसरे संजात हिंसाया उच्चस्तरीयम् अन्वीक्षणं अध्यर्थितवती विश्वविदयालयस्य कार्यकारिपरिषद उपवेशनस्य अनन्तरं वार्ताहरसम्मेलने तया आरक्षिणां कार्याचरणे आपति प्रकटिता प्रोक्तं च यत् आरक्षिबलं अन्मतिं विनैव परिसरे प्रविष्टम् उच्चतमन्यायालय उच्चतमन्यायालयेन उक्तं यत नागरिकता संशोधन नियमम विरूध्य समाहवान परायाम कांग्रेसदलस्य अथ च त्रिप्राया पूर्वमहाराज़ प्रद्योत् किशोरदेवबर्मनस्य याचिकयो ब्धवासरे वादश्रवणं भविष्यति याचिका कर्त पक्षयो अधिवक्तण अभिषेकमन् सिंघवी प्रावोचत यत याचिकास् तत्काल वादश्रवणं कुर्यात् इति

प्रथमं परामर्शोपवेशनं स्टार्ट अप् उद्यम डिजिटल समूहै साकं सञ्जातम्